आगामि द्वादशे दिन देशे विदेशेष् च ग्रू नानक देवस्य सार्द्व पंचशत् तमीं जन्मजयन्तीमालक्ष्य केन्द्रीय मन्त्रिमण्डलस्य निर्णयमाधृत्य शिष्टमण्डलीया यात्रेयं जायते केन्द्रीय मन्त्री हरदीप सिंह पुरी आईसीसीआर प्रमुख डॉविनय सहस्रबुद्धि च अभियानस्यास्य अध्यक्षौ प्रमुखौ च वर्तेता केन्द्र प्रशासनम् लद्दाख केन्द्रप्रशासनेन जम्मू कश्मीर लद्दाख क्षेत्रयो प्राशासनिक कर्मकरेभ्य सप्तम वेतन आयोगस्य लाभोपभोग प्रस्ताव अस्मदीय वार्ताहरेण भणितं यत् मासेऽस्मिन् एकत्रिंश दिनांकत एते केन्द्रशासित प्रदेशत्वेन अस्तित्वे अभिसंस्तृत

संसद् द्वारा अगस्त पञ्चम्या सन्दर्भेडस्मिन् प्रस्ताव एक पारित संसदि जम्मू कश्मीर पुनारचना विधेयकस्य अभ्य्पगमनानन्तरं प्रधानमन्त्रिणा स्वीये सन्देशे देशस्य नाम्नि घोषणा विहितासीत् यत् केन्द्रशासित जम्मूकश्मीर लद्दाख कर्मचारिभ्यश्च समताधारेणैव वित्तीय सुविधा प्रदास्यन्ते उच्चतमन्यायालय सामाजिक संजालम् उच्चतम न्यायालयेनाद्य सामाजिक संजालस्य नियमन सम्बद्धानां सर्वेषां प्रकरणानां विभिन्न उच्च न्यायालयेभ्य स्वस्य पास्त्वे स्थानान्तरणार्थं निर्देशा प्रकाशिता मुखपुस्तक व्हाट्सएप माध्यमेन एतेषा प्रकरणाना शीर्ष न्यायालये स्थानान्तरण अभ्याचन याचिकायाम् आदेशोऽयं प्रकाशित शीर्ष न्यायालयेन सन्दर्भेऽस्मिन् आगामि वादश्रवणं जनवरी मासे निर्धारितम् जम्मूकश्मीर बीडीसी जम्मू कश्मीरे बीडीसी जि प्रखण्ड विकास परिषद नैर्वाचिक प्रचाराभियानस्य समय अद्य सायं समाप्तिं यास्यति अक्तूबर चत्र्विंशे सम्पत्स्यमाणेभ्य बीडीसीअध्यक्षपदस्य निर्वाचनेभ्य आहत्य पञ्चषष्ट्युत्तर सहस्राधिका प्रत्याशिन निर्वाचन प्रांगणे वर्तन्ते सर्वाधिक प्रत्याशिन क्पवाडा जनपदे वर्तन्ते

उभयो राज्ययो मतगणना अक्तूबर चतुर्विशे भविता महाराष्ट्रे पञ्च त्रिंशदृत्तर द्विशत प्रत्याशिनां भाग्य निर्णय भविष्यति हरियाणायामपि मतगणनायै व्यापक सुरक्षा प्रबन्धा प्रकल्पिता सन्ति

रक्षाप्रवक्त्रा आकाशवाणी संसूचिता यत् पाकिस्तानीय भटै अद्य अप्रवर्ति सैन्य स्थात्राणि नागरिक क्षेत्राणि च लक्ष्यीकृत्य बालाकोट क्षेत्रस्य मेण्ढरे गोलिका वर्षणम् आरब्धम् यद्यपि सावधानै भारतीय भटैश्चापि अविलम्बमेव गोलिकाभिरेव पाकिस्तान द्र्भटा प्रत्युत्तरिता

एकस्मिन् ट्वीट सन्देशे श्री मोदिना प्रोक्त यत् सम्भाषणमिद सुष्ठतया सम्पन्नम् उभयोर्मध्ये विभिन्नेष् प्रकरणेष् सार्थकतया विस्तृततया च चर्चा सम्पन्ना प्रधानमन्त्रिणा भणितं यत् मानव सशक्तिकरण विषये बनर्जिन उत्साह स्पष्टतया परिलक्षित